जम्मू कश्मीरप्रकरणत्रिक्री दक्षिय राष्ट्रपतिना पाकिस्तानीय संसदि प्रकाशितानि सर्वाणि वक्तव्यानि भारतक्ष निराकृतानि

तक्रीीत यत् पारम्परिक ज्ञान आधुनिक विज्ञानयोश्व सम्मिलित प्रयोग विश्वस्तरीयोत्पादानां विरचनसिहायक सस्सिति श्रीमोदी अद्य नवदिल्यां वर्मानिकौद्योगिक अन्संधान परिषद सी एस आई आर इत्यस्य उपवध्मिस्य अध्यक्षतां निर्वहति स्म

विदर्यमंत्रालयस्य प्रवक्ता रवीश कुमार एतदपि व्यज्ञापयत् यत् एवंकारकं वक्तव्यं प्रकाशनात् पूर्वं तुर्की राष्ट्रपतिना तथ्यानि समुचितं सविस्तरं च अवगंतव्यानि सर्वप्रथमं तु तुर्कीदर्जीभारतं समख़ एतन्निक विर्तिषु क्षष्ट्री पाकिस्तानात् जनितस्य आतंकवादस्य गभीरा स्थितिनूनं अभिज्ञातव्या

इममद्व विषयमाधृत्य विदर्यप्रवक्ता रवीशकुमार पृष्ठभ्रम् वार्ताभिकरणानां प्रश्नान् समुत्तरति स्म